दिल्ल्यारक्षिबलेन उक्तं यत् जवाहरलालनेहरूविश्वविद्यालये स्थिति इदानीं स्स्थिरा नियन्त्रणाधीना कुलपतिना छात्रा प्न परिसरे अध्ययनाय अध्यर्थिता मृत्य्दण्डो निर्भयाद्ष्कर्ममृत्य्प्रकरणे चत्भ्य दोषिभ्य जनवरी दवाविंश्याम् प्रदत्ता योगप्रचाराय अदय प्रप्रथमान्ताराष्ट्रिययोगदिवसदृश्यश्रव्यसंचार प्रस्कारा

आंग्लनवीनवर्षाभिनन्दनावसरे अमेरीकीयराष्ट्रपतिना साकं द्रभाषे भाषमाण प्रधानमन्त्री न्यागदत् यत् पारस्परिकहितचिन्तनविषये भारतम् अमेरिकादेशन साकं साहाय्यमाचरित्ं तत्परो वर्तते प्रधानमन्त्रिणा विगतवर्ष देशद्वयमध्ये जातेष् महत्वपूर्णेष् योजनास् अपि प्रकाश प्रदत्त योगपरस्कारा सूचनाप्रसारणमन्त्रिणा प्रकाशजावडेकरेण अद्य नवदिल्ल्यां त्रिंशदृृश्यश्रव्यसंचारसंस्था अन्ताराष्ट्रिययोगदिवसदृश्यश्रव्यसम्मानेन सम्मानिताः मन्त्रालयेन योगस्य वैश्विकसन्देशप्रचारप्रसाराय दृश्यश्रव्यसंचारसंस्थानानां सम्मानाय विगतवर्षे जुनमासे एतेषां प्रस्काराणा घोषणा कृता आसीत्

तेनोक्तं यत् एतेषां प्रस्काराणां कृते निर्णायकमण्डलेन द्वात्रिंशद्रत्तरैकप्रविष्टय चिता आसन् जम्मुकश्मीर त्रहत कश्मीरोपत्यकायां पीरपंजालक्षेत्रे जम्मुनगरस्य उध्वक्षेत्रेष् च हय अतिशयो हिमपात अभवत् तत्रैव जम्मूनगरस्य अधोवर्तिष् क्षेत्रेष् वृष्टि संजाता

जवाहरस्रंग इत्यंत्र हिमपातकारणेन यातायातप्रतिबन्धित

जेएनयू दिल्ल्यारक्षिबलेन अद्य उक्तं यत् जवाहरलालनेहरूविश्वविद्यालये स्थिति नियन्त्रणाधीना वर्तते आरक्षिभटा तत्र शान्तिसंस्थापनाय छात्रै सह विचारविमर्शञ्च क्र्वन्ति विश्वविद्यालयस्य परिसरे बाह्यान्तरे स्रक्षारक्षिभटा निय्क्ता सन्ति

जनवरीमासस्य पञ्चमे दिवसे वृष्टिकारणात् गौहाट्यां आयोजिता प्रप्रथमा क्रीडा स्थगिता आसीत् भारतीयक्रीडकौ जसप्रीतब्मराह शिखरधवनश्च अदय मुख्याकर्षणकेन्द्रे भविष्यत